इत पूर्व इंग्लैण्डदेशेन च पंचाधिक द्विशतधावनांका योजिता कोविड ओपनिंग कोरोणामहामारीं विरूध्य संघर्षे राष्ट्र ऐक्यभावनया य्द्ध्यते भवन्तोऽपि अस्माभि सह स्रक्षाया उपायत्रयस्य सङ्कल्प स्वीकुर्वन्तु मुखावरकं सन्धारयन्त् सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्त्

पी एम पी एल आई बजट प्रधानमन्त्रिणा नरेन्द्रमोदिना देशनिर्मित उत्पादनानाम् अधिकप्रतिस्पर्धायुतं स्वीकारयोग्यं च कर्तुम् एतेषां ग्णवत्तायां परिष्कारार्थं बलं प्रदत्तम् अम्ना एतत् वक्तव्यं उत्पादसम्बद्धप्रोत्साहनयोजनाम् अभिलक्ष्य उद्योग संवर्धन आन्तरिक व्यापारविभाग डी पी आई आई टी अपि च नीति आयोगस्यपरान्तरजालीय कार्यक्रमं सम्बोधयता प्रतिपादितम् एतस्या योजनाया प्रारम्भ उत्पादनानां बलप्रदानार्थं उद्योगक्षेत्रेभ्यप्रोत्साहन प्रदानाय आत्मनिर्भरनिर्माणार्थं च विनिर्मितम् अत्रैव श्री मोदिना योजनाया महत्वं प्रदर्शयन् उक्तं यत् एतत् हि उद्योगार्थम् आवश्यक तन्त्रं निर्मास्यति येन उत्पादने ग्णवताक्षेत्रे च परिष्कारं विधास्यति प्न स न्यगादीत् यत् योजनेयं उद्योगानां निर्यातक्षमतानां वर्धने वृत्ते अवसरसृजने अपि च आयक्षेत्रे उपचितिसम्पादने महत्वपूर्णा वर्तते

स्वीडन सम्मेलनम् अद्य स्वीडनदेशस्य प्रधानमन्त्रिणा स्टेफनलोवेन वर्येण साकम् प्रधानमंत्रीनरेन्द्रमोदी आभासीयोपवेशने प्रतिभागितां व्यदधात् पंचदशाधिकद्विसहस्रतमवर्षानन्तरं पंचमतमम् उपवेशनम् आसीत् अस्मद्वार्ताहर न्यगादीत् यत् भारतस्वीडनयो मध्ये सद्भावनापूर्ण मैत्रीसम्बन्धश्च अस्ति यो हि लोकतांत्रिकमूल्य स्वतन्त्रता बहुवाद नियमबद्ध अन्ताराष्ट्रिय व्यवस्थाधारित अस्ति बंगाल असम अधिसूचना पश्चिमबंगाल असमयो संभावित विधानसभानिर्वाचनयो द्वितीयचरण संबन्धी अधिसूचना निर्वाचनायोगेन निस्सारिता पश्चिमबंगालस्य चत्र्ष् जनपदेष् त्रिंशत् स्थानेष् अप्रैलमासस्य प्रथमदिनांके निर्वाचनप्रक्रिया भवितेति द्वितीयचरणाय नामांकनानि द्वादशदिनांकं यावत् स्वीकरिष्यन्ते सहैव मार्चमासस्य पंचदशदिनांकान्तं च नामांकनपत्राणाम् परीक्षणम् करिष्यन्ते सप्तदशदिनांकपर्यन्तं प्रतिभागिन नामांकनानि प्रत्यावर्तयितुं शक्ष्यन्ति विगत विधानसभा लोकसभानिर्वाचनेष् यत्र नवतिप्रतिशताधिक्येन मतदानानि जातानि तत्र निर्वाचनायोगस्य विशेषदृष्टिपात स्थास्यति

यस्मिन् पादोनकोटिप्राय जना मतदानानि विधास्यन्ति

एतदन्तराले कोरोनास्वास्थतामानं एकदशमलवोत्तर सप्तनवति प्रतिशतम् अंकितम् विगते अहोरात्रे त्रयोदश सहस्राधिका जना रोगेनानेन स्वास्थ्यलाभं प्राप्तवन्त षोडशसहस्राधिकाश्च अभिनव कोरोनाप्रकरणानि प्ष्टिं गतानि

ध्यातव्यमस्ति यत् अमरावतीजनपदे विगतपंच दिवसेभ्य षड् शताधिकप्रकरणानि अंकितानि एतदभिलक्ष्य स्थानीयप्रशासनेन कोविडमहामारी शमनार्थं उचितपदक्षेपा स्वीकृता सन्ति ध्यातव्यमस्ति यत् अद्य मुम्बईनगरे महाराष्ट्रस्य राज्यपालेन भगतसिंह कोश्यारिना अपि च सुचना प्रसारणमन्त्रिणा प्रकाशजावडेकरेण च स्वीय प्रथमसुच्यौषधं स्वीकृतम् भारत विनाशकास्त्राणि भारतेन संयुक्तराष्ट्रसुरक्षापरिषद् संचेतिता यत् बूहद्परिमितौ हानिकारकाणि शस्त्रास्त्राणि आतंकवादिसंघा न प्राप्नुयु इत्यस्मिन् विषये सजगतया दष्टिपात स्यात् भारतेन हि रासायनिकानां शस्त्राणां सम्भावितप्रयोगस्य नैष्पक्षिक परिशीलनम अपि अपेक्षितम संय्क्तराष्ट्रस्रक्षापरिषदं संबोधयता भारतस्य उपस्थायीप्रतिनिधिना आर रविन्द्रेण उक्तं यत् दर्दान्त आततायिनां गतिविधय वरिवर्धमाना सन्ति एतदर्थं परिषदा नैष्पक्षिक परिशीलनं कर्तव्यम् यत् व्यापकतया हानिकारक्षमानि शस्त्रास्त्राणि विघटनकारि तत्वानां हस्तेष् न स्युरिति विदेशी निवेश राष्ट्रे विगत अप्रैलमासत दिसम्बरमासपर्यन्तं निवर्तमानवित्तवर्षावधौ नवमासस् सर्वाधिक्येन सप्तषष्टि अर्बुद डालरात्मकं वैदेशिकनिवेशं जातम् यस्मिन् चत्वारिंशत् प्रतिशतात्मिकी वृद्धि परिलक्षिता

नीतिगत परिष्कारै सह सर्वकारद्वारा ये निवेशाभिवर्धका पदक्षेपा समुत्थापिता ते सफलताम् अधिगच्छन्तीति परिलक्ष्यते

क्रिकेट क्रीकेट निकषस्पर्धायां भारतस्य षड्नत्रिशतधावनांकानां समर्जने सप्तक्रीडका पतिता इत पूर्व इंग्लैण्डदेशेन पंचाधिकद्विशतधावनांका एव अर्जिता आसन् क्रीडेयं अहमदाबादनगरस्य नरेन्द्रमोदीक्रीडांणे क्रीडयमाना अस्ति